प्रधानमन्त्रिणा प्रोक्तं यत् मूलभूताधार अस्ति ऐक्यभाव आत्मनिर्भरभारताभियानस्य कोविड एकोविंशत्या राष्ट्रिया स्वस्थतामिति वरिवध्य एक त्रि दशमलवोत्तर सप्तनवति प्रतिशतात्मिका सम्प्राप्ता निर्वाचनायोगेन राज्यसभाया सदस्यत्रयाणां निर्वाचनाय घोषणा विहिता क्रिकेटक्रीडायां इंग्लैण्डभारतयो संघर्ष श्वो भविता चेन्नई नगरे दर्शकरहिते च क्रीडांगणे

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीक्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्य रि ालयन्त् ाणि ादं च यथासमयं प्रक्षालयन्त्

दृश्य श्रव्य संवाद प्रणालिकया उद्घाटितेऽस्मिन् कार्यक्रमे श्रीमोदिना एकस्या डाक मुद्राया अपि लोकार्पणं कृतम् अवसरेऽस्मिन् प्रधानमन्त्रिणा निगदितं यत् घटनेयं वैदेशिक शासनकाले आरक्षीस्थानकेष् अग्निकाण्डस्य एकाकी घटना नासीत् परं ब्रिटिशशासनं विरुद्ध्य लोकाक्रोशस्य सामूहिकाभि व्यक्तिरपि आसीत्

श्रीमोदिना अग्रे उक्त् यत् स्वतन्त्रताया पञ्चसप्तति वर्षाणां पूर्तित्वम् जायते अस्मभ्यम् महद्भ्य स्वतन्त्रतानायकेभ्य श्रद्धांजलि प्रदानस्य स् अवसर अयम्

यस्मिन् महतां स्वाधीनता सेनानीनां स्मारकस्थलेष् नैका कार्यक्रमा भवितार एतदतिरिच्य आराज्ये अनेका स्पर्धा अपि भविष्यन्ति

कोविड अद्यतनम् देशे कोविड नवदश महामार्या स्वस्थता प्रतिशतता सप्तनवति दशमलव एक त्रि मिता पञ्जीकृता विगतास् चत्र्विशतिहोरास् चत्र्विशत्यधिक अष्टशतोतर सप्तदशसहस्रं रोगिण स्वस्थीभूता तत्रैव अस्मात् संक्रमणात् सप्ताधिकैकशतम् रोगिण दिवंगता जाता अपि च नवनवत्यधिकाष्टशतोत्तरद्वादशसहस्रं नवीन प्रकरणानां संख्या प्ष्टिं गता

देशे अद्यावधि प्रायश पञ्चचत्वारिंशत् लक्षमिता जना सूच्योषधप्रदानेन लाभान्विता जाता

तेजस उदग्रयानयो वाय् प्रदर्शनं दर्शकान् उत्साहितं अक्रुताम् वार्ताहरैः साकं एकस्यां वार्तायां हिन्दुस्तान एयरोनॉरिक्स लिमिटेड इत्यस्य अध्यक्ष प्रबन्धनिदेशकश्च प्रोक्तवान् यत् त्रयाशीति एलएसी मार्क आईए इति विमानानां आपूर्त्या आदेश प्राप्त येन हि देशस्य सैन्यक्षमताया सुदृढता सैन्योदयोगस्य च सम्पन्नताया प्रभावो दृष्टिगोचर भवति संसद राज्यसभा राष्ट्रपते अभिभाषणस्योपरि धन्यवाद ज्ञापनस्य संय्क्तसत्रे विपक्षीणां विरोधप्रदर्शने गतिरोधो जातः विपक्षिदलीया नेतार कृषिविधेयकानां परावर्तनमतिरिच्य नान्य पन्था इति घोषयन्त आसन् तैः प्रोक्तं यत् कृषकान् विरुद्ध्य संघर्षः उचितः नास्ति विपक्षिदलस्य नेत्रा गुलाम नवी आजादेन परामर्शोडपि दत्त यत् कृषिविधेयकानि संसद स्थायि समितिं प्रति प्रेषयिष्यत् चेत् सृष्ठ समाधानं समागमिष्यत् रक्तद्र्गीय घटनायाश्च तेन विनिन्दन् कठोराचारो अपेक्षित संवादे प्रतिभागित्वं गृहणन् केन्द्रिय मन्द्रिणा धर्मेन्द्रप्रधानेन प्रतिपादितम् यत् केन्द्रः कृतसंकल्प अस्ति न्यूनतमसमर्थन मूल्यं नैव समापनाय देशस्य कृषकाणां हिताय च तेन साहाय्यं सर्वेषां विकासश्च सर्वेषामिति प्रधानमन्त्रिण घोषम् अनुस्मरन् प्रोक्तं यत् निश्चितसमयावधौ सुनिश्चित निर्णयाय वयं प्रतिबदधा स्मः कांग्रेसदलनेत्रा श्री दिग्विजसिंहेन च निगदितं यत् कृषक श्रमिक सामाजिक कार्यकर्तादीनाम्परि कृतस्य राष्ट्रद्रोहाभियोगस्य निराकरणं स्यादिति न निर्गत निष्कर्षात्मकस्या परिचर्चाया समाप्तिर्जाता विषयेऽस्मिन चर्चा राज्यसभायां श्वो भविता

अनेन मन्त्रालयेन एता परियोजना अस्य वर्षस्य फरवरी मार्च मासपर्यन्तं सम्प्रयिष्यन्ते इति प्रोक्तम् वर्षेऽस्मिन् दविलक्ष पञ्चदशसहस्र अष्टपञ्चाशत् कोटिरुप्यकाणां निवेशस्यापि योजना विदयते एतदतिरिच्य नवीनानां परियोजनानामपि घोषणा घोषिता नवीनास परियोजनास नवीन रेल मार्गेभ्यश्च द्वात्रिंशदधिकनवशतकोटि्याधिक चत्वारिंशतसहस्रं रुप्यकाणि अपि प्रदत्तानि प्नश्च यातायात सौविध्याय पञ्चसहसं त्रिषष्ट्यधिक दविशतं कोटि रुप्यकाणि आवंटितानि इति मन्त्रालयेन निगदितम् सहैव मन्त्रालयोऽयं वार्षिक योजनान्तर्गतं मूलभूत सौविध्यानि यातायात व्यवस्था यात्रिभ्य जन सौविध्येष् च वृध्दे लक्ष्यमपि अन्सरिष्यति

इयं अन्ताराष्ट्रियस्पर्धा वर्षेडस्मिन् विशेषा भविष्यति यतोहि अस्यां दर्शका अन्पस्थिता भविष्यन्ति इति